शीर्ष न्यायालय महा न्यायाधिवक्तारं त्षार मेहताम् आदिशत् यदसौ अद्य पूर्वाहणे सार्ध दश वादनं यावत् राज्यपालस्य तत्पत्रं न्यायालयस्य समक्षम् उप स्थापयेत् यत्र महाराष्ट्राद् राष्ट्रपति शासनस्य अप सरणार्थ संस्तृति नूतन प्रशासन संरचार्थ देवेन्द्र फड़णवीसस्य आमन्त्रणं च सम्ल्लिखिते स्तः ततः पूर्व हयो रविवासरे न्यायमूर्तीनां एन्वीरामन् अशोकभूषण सञ्जीवखन्नानां त्रिसदस्यात्केन न्यायखण्डपीठेन शिवसेना राष्ट्रवादिकांग्रेस कांग्रेस दलानां सा अन्रोध याचिका अस्वीकृता यस्यां दलैरेतै अहोरात्र द्वयाभ्यन्तरे महाराष्ट्र विधानसभायां शक्ति परीक्षाणम् अभियाचितमासीत् न्यायालय स्पष्टमकरोत् यत् स तत् पत्र दवयस्य परिशीलनाज्नन्तरमेव कमप्यग्रिमं निर्देशं प्रसारयिष्यति अत्रान्तरे नव निय्क्तस्य महाराष्ट्रोप म्ख्यमन्त्रिण अजित पवारस्यराष्ट्रवादि कांग्रेस दल प्रम्खस्य शरद पवारस्य च मध्ये तत्तद् विधायकानां स्व स्व पक्षान्यायित्वम् अभिलक्ष्य वाग्य्दधं समारब्धमस्ति महाराष्ट्रम लघतरदलानि अपरतो महाराष्ट्रे नूतन प्रशासन संरचनार्थ सम्प्रति समेषामपि दृष्टि त्रयोदशस् निर्दलीयेष् षोडशस् लघ्तर दलीयेष् च विधायकेष् केन्द्रिता विद्यते इमे एव सम्प्रति विधानसभायां नातिचिरं समायोज्यस्य तत्रत्य शक्ति परीक्षणस्य दिशां निर्धारयितार

पत्राणं परीक्षणं श्वो भविष्यति तत्रत्या प्रत्याशिनो ग्रुवासरं यावत् स्वीयं नाम परार्वतयित् प्रभविष्यन्ति एतच्चरणान्तर्गतं राज्यस्य रांची हज़ारीबाग कोडरमा रामगढ़ प्रभृतीनाम् अष्ट जनपदानां सप्तदशभ्य आसनेभ्यो मतदानानि डिसेम्बर मासस्य द्वादशे दिनांके समन्ष्ठेयानि सन्ति अत्रान्तरे प्रधानमन्त्री श्रीनरेन्द्र मोदी अद्य राज्यस्य डाल्टनगंज पलामू क्षेत्रयो निर्वाचनसभां सम्बोधयिष्यति

अद्यतनानि मतदानानि नाडिया जनपदस्य करीमप्रासनाय उत्तरीय दीनाजप्र जनपदस्य कालियागंजासनाय पूर्वीय मिदनापुर जनपदस्य खड्गपुरासनाय च समायोज्यन्ते